द्विपक्षीयवार्तायां दर्याद्वियस्य सम्बन्धान् सुद्रढीकरणाय विचारविमर्शा जाता एत्यू मुख्यत्वर्म व्यापारस्सम्पर्कश्च विकासस्सहयोगश्च जनानां मध्यडिथ सम्पर्क संस्कृति परस्परहितचिन्तनविषयाणि अतिरिच्य अनक्की विषया चर्चा जाता

दर्यद्विमध्य शिरिवहन सम्पर्क क्षमतानिर्माण संस्कृति आदि क्षमता अपि सप्तसन्धय हस्ताक्षरिता

राष्ट्रपति राष्ट्रपति श्रीरामनाथकोविन्दर्यिक्रितं यत् प्रशासनं सुशासनं सुगमजीवनशैलीं च प्रोत्साहयति अद्य नवदिल्लयां भारतीय समवाय सचिव संस्थानस्य एकपञ्चाशत्तम स्थापनादिवससमारोह संबोधयता श्रीकोविन्दर्यीक्तं यत् उद्यमक्षक्षक् कशल भर्ष्ट्रीवरहितव्य प्रशासन स्निश्चर्य समवायसचिवाना महत्वपूर्णा भूमिका वर्तत रोष्ट्रपति न्यगादीद यत् दर्ष्ट्रिगत्या परिवर्तनं जायत जिनाश्च उत्तुङ्गाकाशं स्पर्शनाय इच्छ्का सन्ति

प्राशासकीय विज्ञप्यां संसूचितं यत् साहाय्यराशि थलसम्मिद्धहताहत कल्याणकोषद्वारा प्रदास्यता कोषस्यास्य स्थापना द्विवर्षपूर्व रक्षामन्त्रालयस्य भूतपूर्वसैन्यकल्याण विभागस्क्रिता आसीत्

रक्षासूत्रान्सारि ज्ञायतक्ति संदिग्धातंकिभि सुरक्षाबलानि लक्ष्यीसात् कृत्यैव ग्रत्व प्रक्षणि विहितम्